केअअउन्नाव केन्द्रीयान्वीक्षणाभिकरणेन उन्नव द्ष्कृति पीडिताया मार्गद्र्घटनाप्रकरणे विविधस्थलेष् सहसान्वीक्षणानि विधीयन्ते अभिकरणेन लखनऊ उन्नाव बांदा फतेहपुर जनपदेषु साम्प्रतं यावत् अन्वीक्षणं विधीयते केन्द्रीयान्वीक्षणाभिकरणेन द्ष्कर्मारोपिणं क्लदीपसिंहसेड्गरं विरुध्य हत्याप्रकरणं पञ्जीकृतमस्ति प्रधानमन्त्री कार्यशाला प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां भाजपेति दलस्य संसत्सदस्यानां कार्यशालाया समापनसत्रं सम्बोधयिष्यति अभ्यासवर्ग इत्याख्या द्विदिवसीया कार्यशाला संसत्सदस्येभ्य संसदि अथ च संसदो बहि तेषाम् आचरण विषयकोद्बोधनाय आयोजिता गृहमन्त्रिणा अमितशाहेन रक्षामन्त्रिणा राजनाथसिंहन दलस्य कार्यवाहकाध्यक्षेण जगत प्रकाश नड्डा वर्येण च कार्यशाला सम्बोधिता

अद्य नवदिल्लयां भारतीयप्रौद्योगिकीसंस्थाने प्रौद्योगिकी प्रदर्शिन्योद्घाटनं विदधता अम्ना निगदितं यत् अनुसन्धानम् उद्योगाना जनाना चावश्यकतान्ग्णं भवितव्यम् सममेव तेन अन्सन्धातभ्य सर्वविधं साहाय्यम् अपि समाश्वासितम् कांग्रेस दलोपवेशनम् कांग्रेस दले अन्वर्तमान नेतृत्व सङ्कटस्य निराकरणाय आगामिने शनिवासरे दलस्य कार्यकारिण्यो पवेशनं भविष्यति कांग्रेस दलस्य महासचिवेन केसी वेण् गोपालेन एकस्मिन् ट्वीट सन्देशे विवरणमिदम् उपस्थापितम् ध्यातव्यमस्ति यत् लोकसभानिर्वाचनेष् पराजयस्य उत्तरदायित्वं स्वीकृत्य राहुलगान्धिना दलस्य अध्यक्षपदात् त्यागपत्रं प्रदत्तमासीत्

छायाचित्रमिदं पृथिव्या विविधरङ्गान्वितं चित्रं प्रदर्शयति

चान्दीप्र केन्द्रात् प्रवर्तमान वर्षस्य द्वितीयं परीक्षणमिदम् अवर्तत

क्रिकेटस्पर्धा भारत वैस्टइण्डीज दलयोर्मध्ये प्रवर्तमानाया विंशति प्रतिविंशति क्रिकेट शुङ्खलाया द्वितीया स्पर्धा अद्य विद्यते